स्वास्थ्यमिति षड् अष्ट् दशमलवोत्तर त्रिनवति मिता संवृत्ता प्रधानमन्त्री नरेन्द्रमोदी श्व पूर्वाहे एकादश वादने स्वीये मासिके मन की बात इति कार्यक्रमे देशवासिभि साकं विचार विनिमयं करिष्यति जम्मू कश्मीरे ऐद प्राथम्येन जनपद विकास परिषद निर्वाचनाना प्रथम चरण सम्पादितम् मतदातृभि बृहन्मात्राया स्वीय मताधिकार प्रयुक्त

प्रिया श्रोतार कोविड नाइन्टीन इति वश्किक संक्रमणं विरुध्य राष्ट्र ऐक्यभावनया युध्यति भवन्तोऽपि संक्रमणं इदं परास्त् सन्नद्वा भवन्त् मुखनासिकाच्छादकं सामाजिकदौर्यान्पालनं पाणिपाद प्रक्षालनञ्च इति उपायत्रयं सर्वदक्त अवधारयन्त् यतोहि कोरोना प्रतिरोधी नियमपालनमेव कुशाग्रबुद्धि परिचायकम् पीएम पुणे प्रधानमन्त्री नरेन्द्रमोदी कोरोना इति वश्विक संक्रमणस्य सूच्यौषध विकास निर्माण प्रक्रियां ज्ञातृं स्वीय नगर त्रयस्य यात्राक्रमे प्णे नगरं अधिप्राप्त पृणे नगरे प्रधानमन्त्री मोदी विश्वस्य ब्रहत्तमस्य कोरोना सुच्यौषध निर्मातु समवायस्य अवलोकनं अकरोत् इति पञ्चाशत् निमेषात्मकीयां स्वीयां यात्रायां श्रीमोदी कोरोना संक्रमण प्रतिरोधी सूच्यौषधस्य विनिर्माण प्रक्रियां अवलोकयत्

इत प्राक् प्रधानमन्त्री मोदी अद्य प्रात अहमदाबादस्थ जाइडस् बायोटेक पार्क इति स्थलमपि अधिगच्छत् तदनन्तर असौ मध्याहे हस्तिबादस्थ भारत बायोटेक इत्यत्र अपि गतवान् आसीत् प्रधानमन्त्री कार्यालय समसूचयत् यत् भारतं कोरोना संक्रमणं विरुध्य संघर्षे निर्णायक स्तरे युध्यति अपि च प्रधानमन्त्रिणो मोदिनो इयं यात्रा महत्तवपूर्णा सेत्स्यति अवधेयास्पदं तथ्यमिदं यत् प्रधानमन्त्री अद्य देशे कोरोना प्रतिरोधी सूच्यौषधस्य विनिर्माण प्रक्रियां समीक्षितं नगरत्रयस्य यात्रां समापादयत् इति पीएम हृद्यिबाद प्रधानमन्त्री नरेन्द्रमोदी इत पूर्व हक्षिबादस्थ भारत बायोटिक इति स्थल प्राप्य कोरोना संक्रमण प्रतिरोधी सूच्यौषधस्य विनिर्माण प्रक्रियां ज्ञातवान् प्रधानमन्त्री कोरोना परीक्षण क्रमे साफल्याय वर्त्तानिकान् वर्धापयत् एकस्मिन् सन्देशे श्रीमोदी प्रत्यपादयत् यत् तेन वझानिका वर्धापिता केन्द्र प्रशासनं वझानिकानां साहाय्याय सक्रियरूपेण कार्याणि आचरति इति

देशस्य स्वास्थ्यलाभ प्रतिशतं अष्ट षड़ दशमलवोत्तर त्रिनवतिमितोऽस्ति संवृत्त स्वास्थ्यमंत्रालयानुसारं अनेन संक्रमणेन स्वस्थीभृयमाना जना प्राय नवपञ्चाशत् सहस्राधिक सप्ताशीति लक्षं यावत् अभृवन् वर्तमानसमये देशे चत्वारिंशदधिक नव शताधिक चतुपञ्चाशत् सहस्राधिक चतुर लक्षा जना सङ्क्रांता गतचतुर्विंशति होरास् द्वाविंशत्यधिक त्रिशताधिक एकचत्चारिशत् सहस्र नूतनप्रकरणानि पब्जीकृतानि अत्रान्तरे संक्रमितजनानां संख्या विवर्ध्य एकपब्चाशत् सहस्राधिक नवत्रिंशत् लक्षं यावत् संवृत्ता विगते अहोरात्रे पञ्चाशीत्यधिक चत्र शतं जना कालकवलीभूता भारतीय आयुर्विज्ञान अनुसंधान परिषद अनुसारेण विगते अहोरात्रे प्राय सप्तपञ्चाशत् सहस्राधिक एकादश लक्षं परीक्षणानि समनुष्ठितानि परीक्षणानां संख्या आहत्य द्वयाशीति लक्षाधिक त्रयोदश कोटि अभूत दिल्ली कोविड दिल्ल्यां गतचतुर्विशतिहोरास् कोरोना संक्रमणस्य द्वयाशीत्यधिक चतुर् शताधिक पञ्चसहस्रं नूतनानि प्रकरणानि पञ्जीकृतानि अत्रान्तरे संक्रमितजनानां संख्या विवर्ध्य प्राय षड़ पञ्चाशत सहम्राधिक पञ्च लक्षा यावत् संवृत्ता दिल्ली प्रशासनेन उक्तं यत् अधना पर्यन्त प्राय नव सहस्राधिक पञ्च लक्षं जना उपचार्यमाणा सन्ति गतचतुर्विशतिहोरास् सप्त त्रिंशत्यधिक नवशताधिक पञ्च सहम्रं जना स्वस्थीभूता सन्ति एवञ्च अष्टनवति जना कालकवलीभूता ओडिशा कोविड ओडिशाराज्ये कोरोना इति वश्विक संक्रमणेन सङ्क्रान्ता आहत्य सप्त चत्वारिंशत्यधिक सप्त शताधिक नव सहस्राधिक त्रिलक्षं रोगिण स्वस्थीभूता ह्य अष्टाधिक नवशतं रोगिण स्वस्थीभूता गतचतुर्विंशति होरास् चतुर्नवत्यधिक पञ्चशतं नूतन प्रकरणानि पञ्जीकृतानि इदानीं रोगिणां संख्या विवर्ध्य नवत्रिंशत्यधिक द्विशताधिक सप्तदश सहस्रं अभूत् इद संस्कृतवार्ता प्रसारणम् आकाशवाणीत प्रसार्यते

मन की बात प्रधानमन्त्री नरेन्द्रमोदी श्व पूर्वाह्ने एकादशवादने स्वीये मन की बात इति कार्यक्रमे देशवासिभि साकं विचारविनिमयं करिष्यति मन की बात इति मासिक कार्यक्रमस्य इद एकसप्ततितमं संस्करणं भविता अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्या द्रदर्शनस्य च सर्वाभि वाहिनीभि प्रसारयिष्यते

प्रधानमन्त्रिण सम्बोधनानन्तरं अनुक्षणं अयं मन की बात कार्यक्रम क्षेत्रीय भाषाष्वपि श्रोत् शक्यते क्षेत्रीय भाषास् अस्य प्न प्रसारणम रात्रौ अष्टवादने भविता

जे एंड के डीडीसी इलखिन केन्द्रशासिते जम्मुकश्मीर राज्ये ऐदं प्राथम्येन आयोजितस्य जनपद विकास परिषद निर्वाचनस्य प्रथमचरणाय पञ्चायत उप निर्वाचनार्थं च अद्य मतदानं सम्पन्नम् मतदानं अष्टचरणेष् समायोज्यते मतदातृभि प्रात सप्तवादनादारभ्य मध्याहं द्विवादनं यावत् स्वीय मताधिकार प्रयुक्त द्वितीय चरणात्मकं मतदानम् आगामि मासस्य प्रथमे दिनाङ्के समनुष्ठास्यते इति एतन्निर्वाचनाथं परिणामोद्वोषणा आगामि दिसम्बर मासस्य द्वाविंशे दिनाड़के भविता निर्वाचनार्थं सुरक्षाव्यवस्था सुदृढा आसन् निर्वाचनायोगेन अन्तिम चरणे संचाल्यमाणाय जम्मुकश्मीर जनपद विकास निर्वाचनाय दृश्य श्रव्य तन्त्रमाध्यमेन मुद्रितपत्रमाध्यमेन च सम्भाव्यमाणस्य निर्वाचन परिणामस्य सर्वेक्षणं प्रकाशनं प्रदर्शनं वा प्रतिबन्धित अस्माकं वार्ताहरेण संसुचितं यत् राज्यस्य निर्वाचनाय्क्ते केके शर्मणा प्रख्यापित सन्देश समसूचयत् यत् सर्वेष् चरणेष् निर्वाचन समाप्ति यावत् एष प्रतिबन्ध प्रवर्तित प्रेज आर्मी गार्ड राष्ट्रपति श्रीरामनाथ कोवन्दिो अद्य राष्ट्रपति भवने स्रक्षाभटानां दलस्य परिवर्तन समारोहस्य साक्षीरभृत् समारोहेऽस्मिन् प्रथम गोरखा राइफल्स् इति संख्यिलस्य पञ्चमं वृन्दं सेरमोनियल आर्मी गार्ड बटालियन इति रूपेण स्वीयं सार्थत्रिवर्षकालिकं कार्यकालं सम्पूर्य उत्तरदायित्वमिदं सिख रेजिमेण्ट इति संख्यिदलस्य षष्ठ वृन्दाय समार्पयत् आर्मी मस्ति हुतिङ्गतस्य भारतीय स्थि बलस्य वीरभटस्य यश देशमुख इत्यस्य सम्पूर्ण राजकीय सम्मानेन साकं अन्तिम संस्कारो व्यधायि ध्येयमस्ति यत् वीरगतिं प्राप्त असौ संख्यिमट यश देशमुख नवम्बर मासस्य षड्डविंशे दिनाड़के जम्मुकश्मीरस्य श्रीनगरे एकस्मिन् जनसम्मर्दयुते स्थले आतङ्कवाद्याक्रमणे वीरगतिं प्राप्तवान् आसीत् क्रिकेट भारत आस्ट्रेलिया देशं च अन्तरा संक्रीड्यमाणाया तिसृणां एकदिवसीय क्रिकेट स्पर्धा मालिकाया द्वितीया स्पर्धा श्व आयोक्ष्यते